प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वतंत्र सक्षमं च हिन्द प्रशांत क्षेत्रं प्रति भारतस्य वचनबद्धता प्रकटिता

पश्चिमबंगाल असम तमिलनाड् केरल पूद्च्चेरी राज्येष् विधानसभानिर्वाचनस्य सज्जता द्रतगत्या प्रवर्धतेतमाम् भारतीय जनता पार्टीतिदलस्य पूर्वनेता केन्द्रियमन्त्री च अद्य पश्चिमबंगालस्य तृणमूलकांप्रेसदलस्य सदस्यतां गृहीतवान् तमिलनाडु विधानसभानिर्वाचने डीएमके इति दलेन स्वीय निर्वाचनघोषणापत्रं प्रस्तुतम्

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

अमुना ह्य सायं काले वैश्विक आयुर्वेदसमारोहं सम्बोधयता प्रतिपादितं यत् जनेष् आयुर्वेदस्य लाभ अस्य रोगप्रतिरोधकक्षमताया महत्वविषयिकी जागरूकताया ज्ञानं प्रवर्धतेतमाम् श्रीमोदिना सावसरे एतदपि सम्दीरितं यत् आय्वेदस्य परम्परागत औषधीनां च वैश्विकस्तरे लोकप्रिय विनिर्माणस्य उचितोऽयं समय अत अमुना एतत्विषयक वैश्विक सम्मेलनसमायोजनस्य परामर्श प्रदत्त प्रधान्मन्त्री प्रावोचत् यत् विश्वस्वास्थ्य संघठनेन भारते वैश्विक परम्परागत औषध केन्द्रस्य स्थापनाया घोषणा विहिता अस्ति यस्मिन् विभिन्न देशेभ्य छात्रा आयुर्वेद परम्परागत औषधीनाम् अध्ययनार्थं भारतम् आगमिष्यन्ति

क्वाडदेशानां प्रथमं आभासियशिखरसम्मेलनं उद्रोधयता श्रीमोदिना प्रतिपादितम् यत् भारतं सर्वेभ्य देशेभ्य स्रक्षाया विकासस्य च विजन सागर इत्यस्य पूर्णरूपेण समर्थनं करोति इति तेनोक्तं यत् कोरोना प्रतिरोध सूच्यौषधं जलवाय् परिवर्तनं च क्वाडसमूहं विश्वकल्याणाय एक रचनात्मक संगठनं प्रस्तुतम् तेन प्रकाशितं यत् संघठनमिदं हिन्द प्रशान्त क्षेत्रे शान्ते स्थिरताया समुद्धे कृते कार्यं करिष्यति अवसरेऽस्मिन् अमेरीकाया राष्ट्रपति जो बाइडेन ऑस्ट्रेलियादेशस्य प्रधानमन्त्री स्काट मोरिसन जापान देशस्य प्रधानमन्त्री योशीहिडे स्गा च उपस्थिता आसन् प्रकाश जावडेकर प्रदर्शनी सूचना प्रसारणमन्त्रिणा प्रकाश जावडेकरवर्येण स्वतन्त्रताया पंचसप्ततितम वर्षोत्सवसम्बद्धः स्वतन्त्रताया अमृत महोत्सवाधारितां प्रदर्शन्या देशस्य विभिन्नेषु षड्स्थानेषु आभासीयमाध्यमेन उद्घाटनं विहितम् एतानि स्थानानि जम्मू इम्फाल पटना भुबनेश्वर पुणे बेंग्लुरु इत्येतानि सन्ति नवदिल्यां प्रदर्शन्या उद्घाटनानन्तरं अमुना उक्तं यत् स्वतंत्रतासेनानीनां महान् बलिदानानन्तरमेव देशोऽयं स्वतन्त्र अभवत् एतादृश्या प्रदर्शन्या माध्यमेन जना स्वाधीनता संग्रामस्य विषये ज्ञानं प्राप्स्यन्ति

अस्मिन् उपक्रमे अद्य डीएमके इति दलेन चेन्नईनगरे स्वकीयदलमुख्यालये स्वीयं निर्वाचनघोषणापत्र प्रस्तुतम् यस्मिन् पंचशतघोषणानि सन्ति घोषणापत्रे डीएमके इति दलेन समाश्वासितं यत् विद्यालयच्छात्रेभ्य प्रात दुग्धं प्रदास्यते अन्नानुमति पत्रधारकेभ्य अन्नस्य कृते चतुसहस्रम् प्रदास्यते शिक्षासम्बद्धऋणम्क्ति भविष्यति इत्यादय विषया घोषणापत्रके सन्ति

असौ पूर्वे भाजपेति दलस्य विभिन्नानि कार्याणि कृतवान् आसीत्

स्वास्थ्यमन्त्रालयेन विज्ञापितं यत् विगतचतुर्विशंतिहोरास् एव त्रि पंचाशत् सहम्राधिक विंशति लक्षाधिक जनै सूच्यौषधम् अवाप्तम् एतदन्तराले कोरोनामहामार्या स्वस्थतामानं अष्ट द्वि दशमलवोत्तर षण्णवति प्रतिशतं प्राप्तम् सम्प्रति देशे कोविडमहामारीत उपचारसतानां जनानां संख्या द्विसहस्रोत्तर द्विलक्षाधिका वर्तते मोदी श्रीलंका प्रेजिटेंड प्रधानमन्त्रिणा मोदिना अद्य श्रीलंकादेशस्य राष्ट्रपतिना गोटाबाया राजपक्षे इत्याख्येन सह दरभाषीय परिचर्चा विहिता अमुना वार्तालापावसरे भारतश्रीलंकादेशयो सामयिकविकासस्य परस्परसहयोगस्य समीक्षा कृता

निगृहीत आतंकवादीसहयोगिनां सम्बद्धता हिजब्ल मुजाहिद्दीन इत्याख्येन आतंकवादी संघठनेन सह अस्ति इति

अन्तः स्नातक स्तरे समायोज्या इयं परीक्षा एकादशस् भाषास् भविष्यति